केन्द्रशासिते जम्मूकाश्मीरे अद्य समायोक्ष्यमाणाय जनपद् विकास निर्वाचनाय सर्वाः सज्जाः सन्ति सम्पूरिताः

स्वास्थ्यलाभे प्रतिशतं षड् षड् दशमलवोत्तर चतुर्नवतिमित परिष्कार

कैबिनेट फैसला केन्द्रीय मन्त्रिमण्डलेन प्रवर्तमान वित्तवर्षे आत्मनिर्भर भारत रोजगार योजना इत्याख्या वृत्यवसरपरा योजना अनुमता अस्यै योजनायै दशाधिक अष्टशतोत्तर द्वाविंशति सहम्र कोटि रूप्यकाणां शशिः वर्तमान कालात् अस्य वर्षस्य त्रयोविंशति वर्ष यावत् अनुमतः नवदिल्ल्यां केन्द्रीय श्रममन्त्रिणा संतोष गंगवारो अवोचत् यत् अनया योजनया सार्थ अष्ट पञ्चाशत् कार्मिका लाभं अवाप्स्यन्ति इति तेन प्रोक्तं यत् प्रशासनं अस्य वर्षस्य अक्टूबर मासादारभ्य आगामि वर्षस्य जून मार्स यावत् वृत्तिप्रदातृभ्यः वर्षद्वयाय साहाय्य उपकल्पयिष्यते इति केन्द्रीय मन्त्रिमण्डलेन सार्वजनिक वाई फाई इति अन्तर्तालीय सौबिध्यायं अपि अनुमतम् केन्द्रीय सूचना प्रौद्योगिकी मन्त्री रविशंकर प्रसादो स्पष्टमकरोत् यत् सार्वजिनक रूपेण अन्तर्जालीय सौविध्यपरा इयं योजना पी श्रे वाणी इति नाम्ना अवज्ञास्यते इति

तेन स्पष्टीकत यत् कृषि सहकारी विपणन समित्या द्वारा संचाल्यमाणाः कृषि विपण्यः नैव पिधास्यन्ते क्रिस्मिन् ट्वीट सन्देशे केन्द्रीय कृषि मन्त्री अवोचत् यत् न खल् कस्यापि कृषीवलस्य भूमेः अधिग्रहणं क्रियते नैव च कृषीवलानां भूमिष् परिवर्तनं विधास्यते इति तेन त्विदिप स्पष्टीकतं यत् सम्पूर्ण देयात् पूर्व अन्बन्धोऽपि समाप्त नैव शक्यते इति

अभिनव संसद भवनमिदं भारतस्य आधारभूत विचारणां प्रतीकात्मकं भविता अवधेयास्पद वर्तते यत् स्वातन्त्र्य प्राप्तिरनन्तर प्रथमोऽयं अवसरः यदा संसद् भवनस्य निर्माण कार्यं विधीयते